भारतीय वायु सैन्यस्य स्थापना द्वात्रिशदधिकैकोनविंशतितमस्य खिष्टाब्दस्य अक्तबर मासस्य अष्टमे दिनांके जाता

समारोहं सम्बोधयन् वाय्सैन्याध्यक्ष एयर चीफ मार्शल राकेश कुमार सिंह देशां आश्वासितवान् यत् वायू सैनिका देशस्य सुरक्षाया अखण्डताया च विषये सन्नद्वा सन्ति राष्ट्रपतिना उपराष्ट्रपतिना प्रधानमन्त्रिणा च वाय्सैनिका अभिनन्दिता केन्द्रीयो गृहमन्त्री अमित शाह भारतीय वाय् सैनाया स्थापनादिवसे अभिनन्दयन् अवादीत् यत् सैन्य साहसस्य प्रतीकोऽस्ति भारतम्पाक भारतेन कट्वालोचितम् यत् पाकिस्तानम् जम्मू कश्मीर राजनीतिक लाभं उद्देश्य महिलानां अधिकार विषयकं विवादम् उत्थापयति संयुक्त राष्ट्र स्थितस्य भारतीय मिशन इत्यस्य वरिष्ठ अधिकारी पाउलोमी त्रिपाठी पाकिस्तानस्य नाम्न ग्रहणं विनैव उकतवती यत् द्भार्ग्यपूर्णमेतत् यत् यस्मिन् देशे महिलानां अधिकाराणां हनने दण्डस्यापि प्रावधानं नास्ति तत् भारतस्य विषये निर्मूलं भणति

तेन प्रोक्तं यत् सुरक्षाया भावनाया उद्देश्येन राज्यस्योपरि ईदृशानां कार्यणाम् आवश्यकता अस्ति कश्मीर समाह्वानम् जम्मू कश्मीरे आतंकवादिनाम् आततिमभिलक्ष्य ततः पर्यटकानां परावर्तन विषयकं राज्य गृह विभागीयं समाद्वानम् एतन्यासस्य दशम दिनांकात् निवर्तयिष्यते उक्त समाह्वानं विगतस्य ऑगस्त मासस्य द्वितीये दिनांके प्रसारितमासीत् एतद विषयको निर्णयश्च श्रीसत्यपाल मलिकस्य आध्यक्ष्ये समाकारिते राज्य स्रक्षा समीक्षोप वेशने प्रशासनेन गृहीतः जम्म कश्मीर भुशुण्डीयुद्धम् जम्मू कश्मीरस्य दक्षिण कश्मीर पुलवामा जनपदस्य अवन्तीपोराक्षेत्रे सुरक्षाबलानां अभियाने एक आतंकवादी हत रक्षासूत्रै सूचितम् यत् अवन्तीपोराक्षेत्रे केषांचित् आतंकवादिनां संकेतप्राप्तेरनन्तरं सुरक्षाबलै निरीक्षणाभियानसमये गोलिका प्रहारे एक आतंकवादी हत

राष्ट्रपतिः श्रीरामनाथकोविन्दः उपराष्ट्रपतिः श्री एम् वेंकैयानायड् प्रधानमन्त्री श्रीनेन्द्रमोदी च पावनेस्मिन् अवसरे देशवासिनो जनान् हृदा वर्धापितवन्त